वित्तमन्त्री निर्मला सीतारमनवर्या प्रावोचत् यत् अन्यदेशानामपेक्षया भारतस्यार्थिक स्थिति सुष्ठुतरा वर्तते

नवदिल्लीस्थे अखिल भारतीयायुर्विज्ञान संस्थाने एम्स इत्यस्मिन् असौ ऐषमो मासस्य नवम दिनांकत समुपचरति स्म वक्तव्यमिदं एम्स चिकित्सालयेन प्रकाशितम् राष्ट्रपतिना रामनाथकोविन्देन उपराष्ट्रपतिना एम् वेंकैया नायड्ना प्रधानमन्त्रिणा नरेन्द्रमोदिना च तस्य निधनम् अन्शोचितम् स्वीय ट्वीट् सन्देशे प्रधानमन्त्रिणा लिखित यत् विराट् राजनेत्रा विद्षा विशिष्टाधिवक्त्रा च अरूणजेटलिना भारताय कृताविस्मरणी योगदानाथं देशो अम् सर्वदा स्मरिष्यति अर्थव्यवस्थायां परिष्कराय असौ सर्वदा स्मरणीयो इति ब्रूते रक्षामन्त्री राजनाथसिंह गृहमन्त्रिणा अमितशाहेन तन्निधनं वैयक्तिक क्षति सम्पवर्णित तत्रैव बिहार उत्तरप्रदेशयो म्ख्यमन्त्रिणौ समेत्य अनेकै मन्त्रिभि श्री जेटलिन निधने शोक संवेदना प्रकटितास्ति

वार्ताहरै सम्भाषमाण भाजपादलस्य कार्यकार्यध्यक्ष जगत प्रकाश नड्डावर्य प्रवोचद्यत् श्व प्रात दशवादने भाजपादल मुख्यालये दिवंगतात्मन अन्तिमदर्शनं कर्त् पारथिष्यन्ति जना तदनन्तरं राजधान्या निगम बोध घाटे स्थले श्री अरूणजेटलिन अन्तिम संस्कारो विधास्यते प्रधानमन्त्री संयुक्त अरब अमीरात प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना प्रोदीरितं यत् भारतं पञ्च त्रिलियन डॉलर मूल्यात्मक अर्थव्यवस्थां विधातं संयुक्त अरब अमीरात देश महत्वपूर्ण सहयोगि भूमिकां निर्वोत् शक्नोति संयुक्त अरब अमीरातस्य एकेन विशिष्टाभिकरणेन साधं साक्षात्कोरे प्रधानमन्त्री न्यगदत् यत् आगामि पञ्चवर्षेष् सप्तदश त्रिलियन डॉलर मूल्यस्य निवेश लक्ष्यमवाप्त् भारतं प्रयत्नरतमस्ति लक्ष्यमिदं अधिगन्तुं प्रशासनं देश विदेशिनां निवेशकै सह सम्पर्क साधयति यूगपदेव श्रीनरेन्द्रमोदी प्रावोचतु संयुक्त अरब अमीरातेन सुदृढ़ सम्बन्ध संवर्धनदिशि नूतन क्षेत्रेषु तत्सहयोगं प्रति आशान्वितं भारतम् देशयो सम्बन्धा सम्प्रित सर्वोत्तमस्थितौ वर्तन्ते अम्नोक्त भारते ऊर्जा खाद्यान्न जलपोतपत्तन विमानपत्तन रक्षाविनिर्माण प्रभृतिष् भृरिक्षेत्रेष् निवेशार्थमभिरूचि समेधितास्ति अनेन शेख मोहम्मद बिन जायदस्य नेतृत्वमपि भृशं प्रशंसितम् अवधेयमस्ति यत् प्रधानमन्त्री नरेन्द्रमोदी संयुक्त अरब अमीराते अद्य रूपे पत्रं समारब्धवान् मध्यैशियायां प्रथमस्तावत् केनापि देशेन सौविध्योऽयं समारब्ध

प्रथमोवसरोऽयं वर्तते यत् कस्मैश्चिदपि भारतीय प्रधानमन्त्रिणे पुरस्कारोऽयं प्रदीयते